अत्र प्रधानमन्त्री मोदी उक्तवान् यत् द्वयोरपि देशयोः मध्ये सम्बन्धाः लोकतन्त्रस्य विधेश्व मूल्योपरि आधारिताः सन्ति

वार्ताः विशदीकृत्या प्रधानमन्त्री नीदरलैण्ड गतदिने प्रधानमन्त्रिणा श्रीमता नरेन्द्र मोदिना नीदरलैण्ड देशस्य प्रधानमन्त्रिणा मार्क रट इत्यमुना साकं दृश्य श्रव्य माध्यमेन एकम् उपवेशनं कृतम् अत्र प्रधानमन्त्री मोदी उक्तवान् यत् द्वयोरपि देशयोः मध्ये सम्बन्धाः लोकतन्त्रस्य विधेश मूल्योपरि आधारिताः सन्ति सममेव जलवायू परिवर्तनम् आतंकवादं वैश्विक महामारीं च प्रति अस्माकं दृष्टिः अपि समाना एव वर्तत हिन्द प्रशान्त क्षेत्रे द्वौ अपि देशौ मिलित्वा कार्य ं कुरुतः अपि च भारत प्रशान्त आपूर्ति श्रृंखलायाः वैश्विक आंकिकीय प्रबन्धन क्षेत्रेष् अपि नवीनानि कार्याणि प्रारभन्ते श्रीमान् मोदी सबलं प्रतिपादितवान् यत् भारतम् जल सम्बन्धीनां विषयान् स्व पारस्परिक सम्बन्धेन नूतनं रूपं प्रदास्यते अत्र श्रीमता मोदिना कोविड महामार्याः काले नीदरलैण्डदेशे वासं कर्वन्तां भारतीय जनानां रक्षां कर्तं मार्क रटं प्रति धन्यवादमपि ज्ञापितम् उत्तर प्रदशि सूच्यौषधम् उत्तर प्रदेशे सूच्यौषधमहोत्सवम् अभिलक्ष्य सर्वे सज्जाः प्रवर्तन्ते राज्ये श्वः प्रभृतिः षड् सहस्रेष् सूच्यौषधकेन्द्रेष् सूच्यौषध महोत्सवः प्रारभते एतदभिलक्ष्य मुख्यमन्त्रिणा योगी आदित्यनाथेन निवेदितं यत् जनैः अवश्यमेव अस्मिन् महोत्सवे सहभागितां कुर्यात् विधि मन्त्री केन्द्रीय विधि मन्त्रिणा रविशंकर प्रसादेन देशे कोविड सूच्यौषधस्य अल्पतायाः कांप्रेस नेतः राहुलगान्धिनः आक्षेपःनिरस्तीकृतः सः उक्तवान् यत् कांग्रेस दलेन शासितेष् राज्येष् कोविड सुच्यौषधस्य अल्पता न अस्ति अपित् स्वास्थ्य सुविधायाः अभावाः सन्ति जम्मू काश्मीरबिजबह्मीरा गतदिने सायं जम्मू काश्मीरस्य प्रादेशिक सैन्य बलस्य एकः भटः मोहम्मद सलीम इति आतंकवादिना हतः सः दक्षिण काश्मीरस्य अनन्तनाग जनपदस्य बिजबेहारा क्षेत्रे स्वनिवासस्थाने आतंकवादिना हतः आसीत् रक्षा विभागस्य प्रवक्त्राप्रोक्त यत् मोहम्मद सलीम इति एकः वीरभटः आसीत् यः सेनायाः विभिन्नैः पुरस्कारैः सम्मानितः आसीत् कोरोना स्थिति केन्द्रीय स्वास्थ्यमन्त्रालयेन प्रतिपादितं यत् साम्प्रतं यावत् देशे प्राय त्रिचत्वारिशत् लक्षोत्तर नवकोटि मितेभ्य लाभार्थिभ्य कोविड़ ऊनविंशति संक्रमण प्रतिरोधि सुच्यौषधानि प्रदत्तानि केन्द्रीय स्वास्थ्यमन्त्रालय प्रत्यपादयत् यत् राष्ट्रे विगतासु चतुर्विंशतिहोरासु प्रायशएकनवति सहस्रोत्तर षट्र्त्रिंशत् लक्षमिता जना सूच्यौषधिं प्राप्तवन्त विगतासू चतुर्विंशतिहोरासू अष्टषष्ट्यधिक नवशतोत्तर एकंत्रिंशत् सहस्राधिक एकलक्ष संख्याकानि नूतनानि कोरोणा विषाणो प्रकरणानि समक्षम् आगतानि

गतदिने रायल चैलंजर्स बेंगुल्रू इति दलेन मुम्बई इण्डियंस दलं द्राभ्यां क्रीडकाभ्यां पराजितम् श्रृंखलायाम् अद्य चेन्नई सूपर किंग्स इत्यस्य दलस्य सम्मुखीकरणं दिल्ली कैपिटल्स इति दलेन सह भविष्यति